प्रधानमन्त्रिणा इयं न्यायस्य सिद्धि प्रतिपादितम्

उच्चतम न्यायालयेन निर्दिष्ट यत् विधानसभायां द्वि वादने कमलनाथ बहमतं सिद्धं करिष्यति राज्यपालेन लालजी टण्डनेन मुख्यमन्त्रिण कमलनाथस्य त्यागपत्रं स्वीकृतम् असौ पञ्चदश मासेभ्य मध्यप्रदेशस्य मुख्यमन्त्री आसीत्

इत प्राक् दोषिण मृत्युपाशम् अपाकर्त् सर्वसंभव विधि नियमा उपयुक्ता दिल्ल्युच्च न्यायालयेन उच्चतम न्यायालयेन च ह्य रात्रौ दण्डापाकरण् इति सम्बद्धा दोषिणाम् अन्तिम याचिका अपि निराकृता

प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रकरणेऽस्मिन् प्रोक्तं यत् अन्तत न्याय विजित तेन ट्वीट सन्देशे प्रोक्तं यत् महिलानां सम्मान तासां सुरक्षा च महत्वपूर्ण प्रकरणं विद्यते प्रधानमन्त्रीकोरोना प्रधानमन्त्रिणा नरेन्द्रमोदिना कोविड नवदश महारोगमालक्ष्य रविवासरे मार्चमासे द्वाविंशे प्रात सप्तवादनात् रात्रौ नववादनं यावत् जनता कर्फ्यू आचरित् जना अध्यर्थिता प्रधानमन्त्रिणा ह्य सायं राष्ट्रं सम्बोधयता प्रोक्तं यत् केवलम् आवश्यक सेवायां संलग्न जना अपहाय कोऽपि जन गृहात् बहि न आगच्छेत् श्रीमोदिना देशवासिन चिकित्सका चिकित्सा कार्मिका प्रति आभार प्रकटित तेन भणितं यत् भारत सद्रश जनसंख्या बहुल विकासशील देशे संक्रमणं सम्मुखीकर्त् संकल्प संयमश्च अनिवार्ये स्त दिल्ली मेट्रो दिल्ली मेट्रो सेवा प्रधानमन्त्रिण नरेन्द्रमोदिन जनता कर्फ्यू समाह्वानमालक्ष्य पिहिता भविष्यति दिल्ली मेट्रो रेल निगमाधिकारिण प्रोक्तवन्त यत् सामाजिक सुरक्षाद्रशा जना गृहेष् एव स्थास्यन्ति अरुणाचल प्रदेश कोरोना अरुणाचल प्रदेश प्रशासनेन शनिवासरात् राज्ये प्रविष्ट सर्वे पर्यटका अवरूद्धा प्रशासनेनोक्तं यत् पर्यटकानां आगन्तुकानां च प्रवेशानुमति पत्राणि तत्काल प्रभावेण निरस्तीकृता मुख्यमन्त्रिणा प्रेमा खांडू प्रोक्तं यत् कोविड नवदश वश्विक महारोगमालक्ष्य अरुणाचल प्रदेशस्य सीमा पिहिताऽस्ति केरल परीक्षा स्थगिता केरल राज्ये कोविड नवदश संकमणमालक्ष्य प्रदेशे अष्टम कक्षात द्वादश कक्षा पर्यन्तं सर्वेषां विश्वविद्यालयानां च परीक्षा स्थगिता परीक्षा तिथिनां घोषणा अनन्तर ं घोषयिष्यन्ति म्ख्यमन्त्रिण अध्यक्षतायामद्य तिरुअनन्तप्रमे उच्च स्तरीय सम्मेलने भागं गुहीतम् चीन कोविड चीन देशे द्वितीयान्य नूतन कोरोना संक्रमण प्रकरणं नाधिगतम् वश्विक स्तरे विषाणो अस्मात् मृत्युपगतानां संख्या एधित्वा नव सहस्राधिक अष्टशत सञ्जाता इटली देशे ह्य कोविड नवदश त सप्तविंशत्युत्तर चत्शशत जना मृता

पूर्वम् उपवेशनमिदं जून दश द्वादशे च निर्धारितमासीत्